दिल्लीविमान त्तनत सप्तत्रिंशत् विमानानां जातं मार्ग रिवर्तनम्

बैंकॉकनगरे वार्ताहरैस्सम्वदन् विदेशमन्त्रालयस्य विदेश सचिव विजय सिंह ठाक्र प्रोक्तवान् यत् प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना भारत आसियान सम्मेलनं आतंकवादस्य प्रकरणम्त्थापितम् प्रोक्तञ्च यत् आतंकवाद शान्ति सुरक्षायां गति अवरोधको वर्तते

श्रीठाक्रेणोक्तं यत् प्रधानमन्त्रिणा श्रीमोदिना थाईलैण्डप्रधान्त्रिणा प्रय्त चान ओ चान इण्डोनेशियाया राष्ट्र तिना जोको विदोदा वर्येण समं दवि ाक्षिकं मेलनं विहितम प्रधानमंत्री प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिनोक्तं यत् भारतस्य एक्ट ईस्ट नीतिः तस्य हिन्दप्रशान्तसागरक्षेत्रस्य महत्वप्र्णो भाग वर्तते अद्य प्रात बैंकॉक नगरे भारत आसियानशिखरो वेशनस्य षोडशे अधिवेशने तेन भणितं यत् समन्वित संगठित आर्थिकरूोण च विकसित आसियानसम्मेलनं भारतस्य आधारभूतहिते वर्तते श्रीमोदिनोक्तं यत् आसियानदेशा भारतस्य च विवर्धित ारस्तरिक सहभागितायां अतिमहत्व ूर्णा विद्यंते

स्थितिरेषा आगामि दवि त्रि दिवसात्मकं यावत् यथावत् सन्धारणस्यानुमानं वर्तते ऋत्विभागीयमहानिदेशेन डॉ क्लदी श्रीवास्तवेन आकाशवाणी सूचिता यत् वृष्टे दिल्ल्यामद्य क्ज्झटिका आवृत्ता

प्रद्षण कारणात् दृश्यता अभावेनादय प्रातः दिल्लीविमान त्तनात् दवात्रिंशत विमानानां समय रिवर्तनं जातम एयर इण्डिया समवायस्य प्रवक्त्रा सुचितं यत द्वादशयानानां मार्ग जय र अमृतसर लखनऊ यात्रार्थ समय रिवर्तित महाराष्ट्रप्रदेश महाराष्ट्रप्रशासनेन दशसहस्रकोटिरूप्यकाणां त्वरितसहाय्यं येभ्य कृषकेभ्य कृतं ये अत्रत्वष्टया संतप्ता आसन्

राष्ट्रपति राष्ट्र तिना श्रीरामनाथकोविन्देन विश्वविदयालया अध्यर्थिता यत् ते व्यावसायिक सामाजिक दायित्व सममेव सामाजिक दायित्वा अपि निभालयेयः असौ अदय गंगटॉक नगरे सिक्किम विश्वविदयालयस्य स्ञ्चमे दीक्षांत समारोहे अभिभाषते स्म तेन संस्थानानि अपि अध्यर्थितानि यत् ते छात्रा किञ्चत्कालार्थ ग्रामेष् प्रेषयेय् तत्र ते ग्रामीणै सह स्वच्छता स्वास्थ्य शिक्षा श्दधाहारस्य च विषये वार्तमानिक स्थितिं रिष्कर्त् कार्य कुर्य